सर्वकार आत्मनिर्भरभारतस्य लक्ष्यमुद्दिश्य कृषकाणाम् हितदिशि विशुद्धमनसा कार्यं कुरूते प्रधानमन्त्री निजसंसदीयक्षेत्रे वाराणस्यां जनसभा सेवोधयति सम अत्रावसरे असौ न्यगादीत् यत् संघ एव पारितं विपक्षिदलं कृषकान् भ्रामयति कृषिसंशोधनविधेयकम् अभिलक्ष्य कृषकविधेयकम् अवलम्ब्य असौ न्यगादीत् यत् कृषका निश्चयेन स्वीयोत्पादनानि आपणेषु विक्रेतुं शक्नुविन्त यदि कश्चन कृषक पुरातनप्रणालीम् आज़यितुं तस्य कृते अवसर वर्तते इहते इत प्राक् लघुकृषका साक्षत् आपणेषु स्वोत्पादनस्य विक्रयणं कर्तुं शक्नुवन्ति स्म परमिदानीं सकलापि एतादृश्य समस्या अपकृता अमुनोक्तं यत् सत्तारूढं राष्ट्रीय जनतान्त्रिकदलनेतृत्वयुतं प्रशासनं कृषकसम्बद्धा स्वीयप्रतिबद्धता प्रप्रयित्ं वचनबद्धमस्ति स्वीय एकदिवसयात्रावधौ प्रधानमन्त्रिणा प्रयागं वाराणसीं अन्तरा निर्मित राष्ट्रियराजमार्ग राष्ट्राय समर्पित अत्रावसरे वाराण्स्यां प्रधानमन्त्री नक्के कार्यक्रमेष् देवदीपावलि उत्सवे चापि सहभागं करिष्यति

समृहत्रवस्य नाम इत्थं वर्तते पुणे नगरस्य जिनोवा बायो फार्मास्युटिकल लिमिटेड हृद्योबादे बायोलॉजिकल ई लिमिटेड अथ डॉक्टर रडिस लेबोरेट्री इति महामार्या नियमनाय उक्त समवाय विधीयमाना वर्क्तिनिक प्रयासा प्रधानमन्त्रिणा अनुशंसिता

सममेव श्रीमता मोदिना उक्त समवाया प्रोदीरिता यत् ते विनियामक प्रक्रिया विषये अपि च एतत् सम्बद्ध प्रकरणमभिलक्ष्य निज परामर्शान् ख्यापयन्तु युगपदेव प्रधानमन्त्री समवायान् निरदिशत् कोरोणा सूच्यौषध विकासे लग्ना समवाया सूच्यौषधम् अथ तत्सम्बद्ध प्रकरणं सरल भाषायां जनसामान्यान् बोधयन्त् अत्रान्तरे सूच्यौषधानाम् आपूर्ति विषयोपि परिचर्चित गत

अवधेयास्पदं वर्तते यत् संधृष्ट राशि विषाणो शमनाय विकास प्रक्रियायां रतानां कोरोणा सूच्यौषधानां शोध विकास परक कार्येष् उपयोक्ष्यते विज्ञान प्रौद्योगिकि मन्त्रालयो अब्रवीत् यत् देशे पंच षट स्थलेष् कोरोणा सूच्यौषध विकास कार्याणि विधीयन्ते साहाव्यराशिरयं उक्तकार्याणि अतोपि द्रतं विधात् सहायक सेत्स्यति

विगत चत्र्विंशतिहोरास् त्रयस्निशदृत्तर त्रिशताधिक पंचचत्वारिशत् सहम्रजना स्वस्थीभूय गृहं प्रति गता स्वास्थमन्त्रालयान्सारं स्वस्थीभूतानां संख्या सप्तचत्वारिंशत्सहस्राधिक अष्टाशीति लक्ष्याधिका जाता सम्प्रति देशे सक्रियप्रकरणानां संख्या द्वि पंचाशदृत्तर नवशताधिक षड् चत्वारिंशत् सह म्राधिक चतुर्लक्ष्यम् वर्तते गतचतुविंशति होरासु द्वि सप्तति उत्तर सप्तशताधिक अष्टत्रिंशत् सहस्रं नूतन कोरोना प्रकरणानि प्ष्टिकृतानि भारते मृत्युमानं एकदशमलव चत्ः पंच प्रतिशतं वर्तते यत् वश्रिकस्तरे सर्वतोन्यूनं वर्तते

पर्व अद सिक्खधर्मस्य प्रथमग्रो गुरू नानक देवजी वर्यस्य जन्मोत्सवं उपलक्ष्य आमान्यते गुरूनानक देववर्य सिक्खधर्मस्य संस्थापक अवर्तत ऐषम गुरूनानकदेववर्यस्य एक पंचाशद्ततर पंच शततम प्रकाशोत्सव अस्ति अत्र पवित्रदिने श्रद्धालव प्रार्थना कीतने संकलिता भवन्ति अमृतसरे स्थिते स्वर्णमन्दिरे गुरूपर्व महतोल्लासेन परिपाल्यते अत्रोपलक्ष्ये पंजाबस्य मुख्यमन्त्री क्ष्टिन अमरिन्दर सिंह देशवासिनो वर्धापयत असौ सुल्तानपुरलोधी अथ डेरा बाबा नानक गुरूद्वारा स्थलयो प्रार्थना कीर्तने सहभागम् आवहत् अत्रावसरे ऐतिहासिके श्री बेर साहिब गुरूद्वारा स्थले अथ एतत् सम्बद्धे बाबा नानक नगरे नक्कीसां विकास परियोजनानाम् आधारशिलां चापि मुख्यमन्त्री स्थपितवान् गरूनानकजयन्ती ग्रूनानकजयन्तित्यावसरे राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च देशवासिभ्य श्भकामना प्रदत्ता अवसरमुपलक्ष्य राष्ट्रपतिना रामनाथ कोविन्देन उदीरित यत् गुरूनानकमहोदमाना जीवनं पथप्रदर्शक प्रेरणादायकम्य वर्तेते अनेन एकताया सामंजस्य भ्रतृत्वभावनाया शिष्टाचारस्य कठिनपरिश्रमंस्य सन्देशा प्रदत्ता सममेव उपराष्ट्रपतिना श्री वेंक्छी नायड़ना प्रोक्तं यत् अयं सिखधर्मेस्य संस्थापक सत्यस्य आदर्शस्य च प्रतीकभूतत्वेन अभिज्ञायते